मानव संसाधन विकास मन्त्रालयेन स्पष्टीकृतं यत् संशोधित नागरिकताऽधिनियमं विरुध्य सम्प्रति प्रवर्तमानस्य जनान्दोलनस्य मध्ये छात्राणां सामाजिकाऽन्तर्जालीयान् प्रोत्तेजक विचारान् गवेषयित्ं प्रशासनेन आईआईटी आईआईएम् संस्थानानि विभिन्ना विश्व विश्वविद्यालयाश्च नैव प्रोक्तानि देश विदेशस्थानां विभिन्न विश्वविद्यालयानाम् एकादश शताधिकै शिक्षाविद्धि शोधार्थिभि गणमान्यैश्च सद्य प्रसारिते समवेत वक्तव्ये संशोधित नागरिकताऽधिनियमस्य समर्थनं विहितमस्ति

प्रधानमन्त्रीजनसभा प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य प्रात नवदिल्ल्यां रामलीला मैदान परिसरे जनसभामेकां सम्बोधयिष्यति दिल्ल्याम् एक त्रिंशदत्तर सप्तशताधिक सहम्र संख्यकास् अनधिकृत वसतिष् नातिपूर्व भू सम्पदाऽधिकारं प्राप्तवन्तो निवासि जना कार्त्तज्य सभायामस्यां भागमावक्ष्यन्ति दिल्ली भाजपाऽध्यक्ष मनोज तिवारी व्यज्ञापयत् यदेतादृशेष् चत्वारिशल्लक्ष प्रायेष् लाभर्थिष् एकादश लक्षाधिकानां जनानां हस्ताक्षराणि अद्य जनसभास्थाने श्रीमोदिने समर्पयिष्यन्ते

एतस्याधिनियमस्य समर्थकेष् राज्यसभासदस्य स्वपन दासग्प्ता शिलौंगस्थ भारतीय प्रबन्धन संस्थानस्य अध्यक्ष शिशिर बजोरिया नालन्दा विश्वविद्यालयस्य क्लपति सुनयना सिंह जवाहरलाल नेहरू विश्वविद्यालयस्य प्राध्यापक ऐनृल हसनश्च अन्यतमा सन्ति तै अध्यर्थित यज्जना विवादान् विहाय देशे शान्ति सन्धारयेयु